प्रधानमन्त्री नरेन्द्र मोदी मन की बात इति कार्यक्रमे अद्य पूर्वाह्ने एकादशवादने जनानां समक्ष स्वीयं मनोगतं प्रस्तोष्यति

वित्तमन्त्री निर्मला सीतारमणः अव्रवीत् यत् बैंक क्षेत्रे भद्रतर नियन्त्रक तन्त्र सुनिश्चेत् प्रशासनेन प्रयासाः विधीयन्ते कोलकातायाम् अनुवर्तमानायाम् अहोरात्र क्रिकेट् निकष स्पर्धायां अद्य तृतीये दिवसे बांग्लादेशदलं षट् क्रीडकाणां हानिपूर्वकं समर्जितेभ्यः द्वापञ्चाशदधिक शत धावनांकेभ्यः अग्रे क्रीडिष्यति

न्यायमूर्तीनां एनवी रमन्ना अशोकभूषण संजीवखन्ना इत्येतेषां खण्डपीठेन विषयेऽस्मिन् अद्य पूर्वाहे साधैंकादशावदने वादश्रवणं विधास्यते विधायकाना क्रय विक्रयण वारयित् मुख्यमन्त्रिणा देवेन्द्र फडनवीशेन चत्र्विंशति होरावधौ सदने बहुमतपरीक्षणार्थम् अध्यार्थयत् मन की बात प्रधानमन्त्री नरेन्द्र मोदी मन की बात इति कार्यक्रमे अद्य पूर्वाह्ने एकादशवादने जनानां समक्षं स्वीयं मनोगतं प्रस्तोष्यति आकाशवाण्याः मासिक कार्यक्रमस्य अयम् ऊनषष्टितमः अंकः भविष्यति आकाशवाण्याः द्रदर्शनस्य च सकलाभिः वाहिनिभिः कार्यक्रमोऽय प्रसारयिष्यते आकाशवाण्या अस्य कार्यक्रमस्य हिन्दीभाषायाम् प्रसारणस्य अनन्तरम् कार्यक्रमोऽयं क्षेत्रीय भाषासु प्रसारविष्यते अस्य कार्यक्रमस्य पूनः प्रसारण सायम् अष्टवादने विधास्यते पूर्वोत्तर केन्द्रीय पूर्वोत्तर क्षेत्र विकास मन्त्री जितेन्द्रसिंहः अद्य अवादीत् यत् अन्य विभागैः सह पूर्वोत्तर अपि केन्द्रस्य प्राथमिकता वर्तते अपि च रेल विमान राजमार्ग सम्पर्क वर्धनाय नूतन पदक्षेपाः उत्थापिताः श्री सिंहः वाराणस्यां चतुर्दिवसीय पूर्वोत्तरमहोत्सवस्य उद्घाटनानन्तरं संभाषते स्म

सहकारिता बैंकेष् केष् चित् प्रवञ्चना प्रकरणेष् सन्दर्भयन्त्या श्रीमती निर्मल सीतारमणेन प्रोक्त यत् स्वीय पर्यवेक्षण भूमिका सुदृढीकत्त् रिजर्व बैंकेन पदक्षेपाः प्राख्याः असौ गतसायं चैन्नई नगरे जी रामचन्द्रन व्याख्यान मालायाम् अभिभाषते स्म

क्रिकेट् कोलकातायाम् अनुवर्तमानायाम् अहोरात्र क्रिकेट् निकष स्पर्धायां भारतीय दलं स्वीय गृहे अनुक्रमं द्रादश वारं स्पर्धाश्रृंखलेय स्वायत्तीकतुं समीहते